लोकसभाकार्यजातं सायं सप्तवा नम् यावत् स्थगितम् केन्द्र प्रशासनेन पूर्ण पिधानावसरे उत्पा ने संजात न्यूनतां पूरयितूं यन्त्रागारेष् कार्यावधौ वृद्धि सम्बद्ध राज्यप्रशासनानां प्रस्ताव निराकृत एशियाया बृहत्तमा ऐरो इंडिया इत्याख्या प्र र्शनी अद्य रक्षामन्त्रिणा राजनाथ सिंहेन बैंगलूरू नगरे समुद्घाटिता भारतं जगति प्रथमं राष्ट्रं संवृत्तम् यत्र चत्वारिंशत् लक्षाधिक जनेभ्य कोविड सूच्यौषधं प्र त्तम्

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीक्वन्त् मुखावरकं सन्धारयन्तु सामाजिकदौर्य परिपालयन्तू पाणिपादं च यथासमयं प्रक्षालयन्त् राज्यसभा राज्यसभायाम् अद्य राष्ट्रपते अभिभाषणस्य धन्यवा प्रस्तावम् अवलम्ब्य चर्चा समारब्धा एत र्थ प्रश्नकाल स्थगित चर्चा सहभागितां क्र्वन् विपक्षि लानि कृषकाणां विरोध प्र र्शनमालक्ष्य कृषि सम्बद्धानां विधेयकानां निरस्तीकरणं याचितवन्ति विपक्षि लै प्रोक्तं यत् कृषकान् विरूदध्य संघर्ष नास्ति उचित विपक्षि लस्य नेता ग्लाम नवी आजा अवोचत् यत् कृषि विधेयकानि संस स्थाइ समितिं प्रति प्रैषयिष्यत् चेत् सुष्ठु समाधानं समागमिष्यत् अत्रांतरे गणतन्त्र शिवसावसरे कृषकान् ोलनावधौ रक्त र्गे घटिता घटना विनिन्धिता प्रोक्तं च घटनायां संलिप्तानां विरोधे कठोरा पि कठोराचरणं भवेत य्गपोव अम्ना सांस शशि थरूरं अथ कतिपय पत्रकार कर्मिण विरूद्धय ोशद्रोह प्रकरणस्य पंजीकरण विषयम् अधिकृत्य प्रशासनं आलोचितम् अन्येपि सांस ा उक्त घटनाया निन् ां कुर्वन् उच्चतमन्यायालयेन घटनाया अन्वीक्षणार्थं अभियाचितवन्त अपरत्र कृषि विधेयकत्रयं विरूदधय लोकसभा सांसप्रैः कृत कोलाहल कारणात् लोकसभायां कार्यजातं सायं सप्तवा नं यावत् स्थगितम आमआदमीपार्टीतिदलम् आम आ मी पार्टीति लस्य त्रय सांस ा बलात् राज्यसभाया बहि प्रेषितवन्त एते राज्यसभाया कार्यजातस्य रोधनाय निलम्बिता आसन्

सभापतिना वारं वारं स्व स्थाने प्रत्यावर्तनाय ते निवेपिता नैवं अनुपालने सति सांस ान् विरूद्धय राज्यसभाया निलम्बना श प्र त्त सभापतिना एम् वेंकैया नायड्ना

श्रममंत्री संतोष गंगवार अदय राज्यसभायां एकस्मिन लिखितोत्तरे प्रावोचत् यत् अनेन गताशताब् स्य अष्टचत्वारिंशत तम वर्षस्य यन्त्रागाराधिनियमस्य वर्तमान प्रावधानेष् संशोधनाय राज्येभ्य विधेयकानि प्राप्तानि परं मंत्रालयेन एतेष् प्रस्तावेष् सहमति नैव प्र त्ता ऐरो शो एशियाया बृहत्तमा ऐरो इंडिया इत्याख्या प्र र्शनी अद्य रक्षामन्त्रिणा राजनाथ सिंहेन सम्द घाटिता इयं प्र र्शनी बैंगलूरू नगरे समायोजितास्ति अत्रावसरे कर्णाटकस्य मुख्यमन्त्री बीएस् ये िय्रप्पा केन्द्रीयमन्त्री डी वी स ानन् गौड़ा सेनात्रयस्य प्रमुखा रक्षोत्पा न विभागस्य वरिष्ठाधिकारिणश्च सम्पस्थिता अवर्तन्त कार्यक्रमं सम्बोधयन् रक्षामन्त्री राजनाथ सिंह स्वऐशे निर्मितानां शस्त्राणां संवर्धमान आपूर्ते उल्लेखं व्य धात् रक्षामन्त्रिणा सममेव ऐशे नागरिक उड्डयन क्षेत्रस्य विवर्धमानं अभियाचनं आलक्ष्य एतत्सम्बद्धानि संस्थानानि विशेषज्ञा कार्यकर्त्तारश्च आमन्त्रितानि तेनेक्तं यत उदयोग जगतः सम्बदधानां कार्याणां सुचारू संचालन विषये भारतं साम्प्रतं त्रि षष्टि तमं स्थानं भजते श्री राजनाथ सिंह भारते समारप्स्यमानाय विनिर्माण संयन्त्र कार्यक्रमाय भारती समवायै समं सम्मिल्य कार्याचरणाय निवेशकान् समाहवयत् रक्षामन्त्री सबलं समुपीरितवान् यत् मेक इन इण्डिया उपक्रम साम्प्रतं मेक फॉर वर्ल्ड अर्थात् विश्वाय निर्माण यात्रा विद्यते अपि च अमूना उक्तं यत् च भारतं निज क्षेत्रीय अखण्डताया स्रक्षां सुदृढतया कर्तम् क्षमम् अस्ति सीम्नि भूमिसम्बद्धं न कथमपि परिवर्तनं सहिष्यते आतंकि गतिविधीनां च कठोरं प्रत्युत्तरं प्र ास्यते अत्रावसरे प्रधानमन्त्री नरेन्द्रमोधी न्यगाधीत् यत् रक्षा ऐरो स्पेस् इति क्षेत्रे भारते असीमिता शक्ति विद्यते

भारतं जगति प्रथमं राष्ट्रं संवृत्तम् यत्र चत्वारिंशत् लक्षाधिक जनेभ्य कोविड सूच्यौषधं प्र त्तम् भारतेन कीर्तिमानमिप् केवलं अष्टा श शिनेष् एव प्राप्तम् कोविड संक्रमणात् स्वास्थ्य लाभमितौ अन्गिनं परिष्कारो दृश्यते उपचर्यमाणानां रोगिणां अपि न्यूनतां उपैति अवधेयं यत् फरवरी मासस्य प्रथमे णिने भारतं पंचशीर्षराष्ट्रेष् अविद्यत यत्र सुच्यौषध कार्यक्रम त्वरया विधीयते

स्वास्थ्य मन्त्रालयानुसारं विगते अहोरात्रावधौ अष्टाशीति सहस्राधिक एक लक्षं संख्याकेभ्य जनेभ्य कोरोना सच्यौषधं प्र त्तम् एत तिरिच्य राष्ट्रे महामार्या आरोग्यम् आप्तवतां प्रतिशतता इ ानीं सप्त नवति शमलव शून्य अष्ट परिमिता विदयते विगतास् चत्र्विशति होरास् भूयोपि चतुर्धश सहस्रं संक्रमण ग्रस्ता रोगिण स्वास्थ्यलाभं प्राप्तवन्त मन्त्रालयानगुणं साम्प्रतं यावत् चत्र्लक्षाधिक एक कोटितो प्यधिका विषाणो पीडिता जना प्रागेव स्वस्थीभूता वर्तमान समये विषाणु पीडितानां सक्रिया संख्या सप्त पंचाशाुत्तर षष्टि सहस्राधिक एकलक्ष मिता वर्तते आक्रमणम महाराष्ट्रस्य वर्धा जनपाे उत्तम ग्लावा लौह संयंत्रे विस्फोट कारणात पंच त्रिंशत अधिक श्रमिका व्रणिता सूच्यन्ते